लोकतन्त्रस्य सफलतायै अमुना जना वर्धापिता

राजस्य निवासिभि राष्ट्रपित् महात्मगांधिन ग्रामस्वराजाय सकाररूपं प्रदत्तम्

अत्रावसरे प्रधानमन्त्रिणा प्रोक्तं यत् प्रशासनं केन्द्रशासित प्रदेशस्य समग्र विकासाय प्रतिबद्धमस्ति आय्ष्मान भारत सेहत इत्याख्याया योजनाया अंतर्गतं जम्मूकश्मीरस्य प्रत्येकं लाभार्थिभ्य पञ्चलक्षरूप्यकाणि यावत् निशृत्कं चिकित्सा सौविध्यं प्रदास्यते श्रीमोदी प्रत्यपादयत् यत् योजनायामस्यां चिकित्सा सौविध्यं जम्मूकश्मीरस्य प्राशासनिक चिकित्सालयान् अतिरिच्य सम्पूर्णदेशे उपलप्स्यते अत्रावसरे गृहमन्त्री अमितशाह जम्मूकश्मीरस्य उपराज्यपाल मनोज सिन्हा च उपस्थितौ अवर्तताम अमितशाह केन्द्रीयो गृहमन्त्री अमितशाह अद्य गौहाट्याम् आमीन गांव स्थले एकस्मिन् कार्यक्रमे नैकासां विकासपरियोजनानां श्भारम्भम अकरोत गौहाट्याम आयूर्विज्ञानमहाविद्यालयस्य स्थापना समारोहे केन्द्रीय गृहमन्त्री मुख्यातिथित्वेन उपस्थितोऽभवत् अत्रावसरे राज्यस्य मुख्यमन्त्री सर्वानन्द सोनोवाल तदीय मन्त्रिमण्डलीय सहयोगिनश्च उपस्थिता अवर्तन्त गृहमन्त्री भाजपा नेत्णामुपवेशने अपि उपस्थाष्यति गडकरी साक्षात्कार राजमार्ग परिवहन सूक्ष्मलध् मध्यमोद्यममन्त्री नितिन गडकरी प्रावोचत् यत् प्रशासनं राष्ट्रस्य पृथक् पृथक् भागान् संयोजयित् द्वाविंशति हरित राजमार्ग निर्माणं विदधाति

नितिन गडकरिणा साकम् अयं संवादो रात्रौ सपाद नववादने आकाशवाण्या एफ़एम़ गोल्ड प्रवाहिकात श्रोतृभि श्रोतृं शक्ष्यते कोविड् नवदश भारते कोविड् नवदश सङ्क्रमणात् स्वास्थ्यलाभमिति संवध्य पञ्चनवति दशमलव सप्त अष्ट प्रतिशन्मिता संवृत्ता इदानी यावत् प्राय चत्वारिशत् सहम्रधिक सप्तनवति लक्षमिता रोगिण आरोग्यं प्राप्तवन्त स्वास्थ्यमन्त्रालयान्सारेण विगते अहोरात्रे द्विशताधिक द्वाविंशति सहस्रजनेष् संक्रमणस्य पृष्टिरजायत

मन की बात प्रधानमन्त्री श्रीनरेन्द्रमोदी श्व आकाशवाण्या मन की बात कार्यक्रमे देश विदेशस्थै जनै साकं निजविचारान् विनिमयीकरिष्यति मासिक रेडियो शृंखलाया अयं कार्यक्रमः श्व प्रातः एकादश वादने आकाशवाण्या द्रदर्शनस्य च सर्वास् वाहिनीष् श्रृतिगम्यो भविष्यति

सममेव आकाशवाण्या द्रदर्शनस्य प्रधानमंत्री कार्यालयस्य सूचनाप्रसारणमंत्रालयस्य च यू ट्यूब वाहिनीषु अपि एष कार्यक्रम प्रसारयिष्यते भाजपा कृषका भाजपा नेता दुष्यन्तकुमार गौतम प्रावोचत् यत् कांप्रेसदलं कृषकाणां विरोधप्रदर्शनम् हिंसकान्दोलनत्वेन परिवर्तथितुम् इच्छति

आरक्षिभि च गतदिने ते आक्रान्ता अमुनोक्तं यत् पञ्जाबरक्षिबलस्य कार्याचरणं कांप्रेस दल प्रायोजितम् अवर्तत अथ च यदि भाविदिनेष् हिंसकान्दोलनं भविष्यति चेत् तत् विपक्षिदलानाम् उत्तरदायित्वं भविष्यति संस्कृतसाप्ताहिकी प्रियश्रोतार संस्कृतजगत्सम्बद्धै विभिन्न क्रियाकलापै संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्या एफ्एम्गोल्ड् प्रवाहिकात प्रतिशनिवासरं पूर्वाहि विंशत्युत्तरैकादशवादने प्रसार्यते अस्य कार्यक्रमस्य पुन प्रसारणं तदप्रिमे दिने प्रति रविवासरेऽपि तस्मिन्नेव काले श्रोतृभि श्रोतुं शक्ष्यते

पत्रसूचना कार्यालय पत्रसूचना कार्यालय तेषां पत्रकाराणां विवरणस्य संकलनं विदधाति येषां मृत्यु कोविड सङ्क्रमणकारणेन अभवत् अस्योदेश्यं तादृश पत्रकाराणां परिवारेभ्य साहाय्यं प्रदानं विद्यते विवरण संकलनाय पत्रसूचनाकार्यालयस्य अन्तर्जालपटले प्रारूपम् उपस्थापितमस्ति आवश्यकपत्राणां सूचिरपि तत्र विद्यते राजस्थानम् राजस्थानं वित्तमन्त्रालयस्य सुगमतया वाणिज्य सौविध्यस्य सफलतया प्रवर्तन कर्तष् षड़ राज्येष् सम्मिलितम़ इदानी राजस्थानं मुक्तविपणौ एकत्रिंशदुत्तर सप्तशताधिक द्विसहस्रकोटि रूप्यकाणाम् अतिरिक्त ऋणं स्वीकर्तं क्षमते क्रिकेट ऑस्ट्रेलिया देशस्य मेलबर्न नगरे अनुवर्त मानायां भारत ऑस्ट्रेलिया दलयो द्वितीय क्रिकेट निकषस्पर्धायां प्रथमे दिने क्रिडावसानं यावत् ऑस्ट्रेलिया दलेन प्रथम पर्याये पञ्चनवत्युत्तरैकशतं धावनाङ्का समर्जिता प्रत्युत्तरे भारतेन क्रीडकेकस्य हानौ षट्त्रिंशत् धावनाङ्का समर्जिता